राष्ट्रियाऽन्वीक्षणाऽभि करणम् विगते जून मासि अटारी सीमावर्तिनि एकीकृत निरीक्षण केन्द्रे द्वात्रिंशद्त्तर पञ्चशत कीलोग्राम परिमितस्य हेरोईन इति मादक पदार्थस्य अधिग्रहण प्रकरणे राष्ट्रियाऽन्वीक्षणाऽभि करणेन मोहाली स्थे विशिष्ट न्यायालये एकादश आरोपिणो जनान् विरुध्य ह्य आरोप पत्रं पञ्जीकारितम्

संघर्षविरामोल्लंघनम् जम्मु प्रखण्डस्य सीमावर्तिनि राजौरी जनपदे गतदिने पाकिस्तानीय सैन्य बलै द्वितीय वारं संघर्ष विरामोल्लंघनं विदधन्द्र भारतस्य अप्रिम स्थात्राणि जनवसति क्षेत्राणि च लक्ष्यीकृत्य गोलिकायुध वर्षणं विहितम् रक्षा सूत्रै आकाशवाणी विज्ञापिता यत् तदनन्तरं तत्र सन्नद्वानि भारतीय भट वृन्दानि तदन्रूपमेव प्रतिप्रहारान् व्यदधु तुमुलाक्रमणेऽस्मिन् भारतीय पक्षतो न कापि जन धन क्षति सूच्यते

एतच्च तथ्यं गतदिवसे जम्म्वां विद्यालयीय शिक्षा विभागस्य आयुक्त सचिवा सरिता चौहान प्रकाशितवती सैन्यप्रमुख स्थल सैन्य प्रमुख जनरल् विपिन रावत अब्रवीत् यद् भारतीय सैन्य बलानि मानवाधिकार नियमानां सर्वाधिकमनुपालनं कुर्वन्ति तेनोदीरितं यत्तै भटै न केवलं मानवाधिकाराणां परिरक्षणमेव विधीयते अपि तु तेषां विपरीता स्थितय अपि सधैयं संमुखीक्रियन्ते स गतदिवसे नवदिल्ल्यां राष्ट्रिय मानवाधिकारायोगस्य कार्यक्रममेकं सम्बोधयति स्म शीतलहरी दिल्ली समेतेष् प्रायश समस्तेष्वपि उत्तर भारतीय क्षेत्रेष् शैत्य प्रकोप सम्प्रति परां काष्ठां स्प्रशति गतदिवसे राष्ट्रिय राजधान्यां तापमानं चतुर्दशमलव द्वि परिमितम् आकलितम् जम्म कश्मीर विगत निशीथे प्रवर्तमान शीतर्तो अद्यावधि न्यूनतमं तापमानम् अभिलिखितम् एवमेव हिमाचले राजस्थाने अन्येष् च प्रदेशेष् नैकानि स्थलानि तीव्रतरं शैत्य प्रकोपं संमुखीकुर्वन्ति ऋत्विज्ञान विभाग व्यज्ञापयत् यदेषा शीत लहरी आगामिनि अहोरात्र युगले अन्यान्यपि कतिचन क्षेत्राणि भूयसा परिव्याप्तुमहीति